अथ वार्ता विस्तरेण निर्वाचनायोग केन्द्रीय निर्वाचनायोगेन अद्य पश्चिम बंगाल तमिलनाडु केरल असम पुदुच्चेरी राज्येषु विधानसभा निर्वाचनानि समालक्ष्य निर्वाचनकार्यक्रमस्य समुद्घोषणा कृता पश्चिमबंगाले चतुर्णवत्युत्तर द्विशतासनेभ्यः तमिलनाडौ चतुस्त्रिंशदुत्तर द्विशतासनेभ्यः केरले चत्वारिंशदुत्तरक्कशतासनेभ्य असमप्रदेशे षड्विंशत्युत्तरक्कशतासनेभ्यएवञ्च केन्द्रशासित प्रदेशेपुदुच्चेयां च त्रिंशदासनेभ्य विधानसभानिर्वाचनानि भविष्यन्ति

वित्तीय सेवा क्षेत्रे आयव्ययसंकल्पपत्रस्य कार्यान्वयनमुपलक्ष्य आयोजितम् उपवेशनं सम्बोधयता प्रधानमन्त्रिणा भणितं यत् वित्तीयक्षेत्रस्य विषये प्राशासनिकदृष्टिकोण पूर्णतया स्पष्टो वर्तते प्रधानमन्त्री नरेन्द्रमोदी प्रावोचत् यत् विश्वासपारदर्शिता च वित्तीयक्षेत्रस्य आधारस्तम्भा सन्ति श्रीमोदिना प्रतिपादितं यत् वर्तमानसर्वकारस्य शासने बैंकीय क्षेत्रे बैंकेतरक्षेत्रे च महत्वपूर्णानि परिवर्तनानि सज्ञातानि प्रधानमन्तिणा केन्द्रीयायव्यय संकल्पपत्रकस्य प्रावधानानां विषये स्वविचारान् प्रकटयता कथितं यत् तेन वित्सम्बद्ध निज क्षेत्राणां सक्रियभूमिका सबलं प्रतिपादिता श्रीमोदिना प्रतिपादितं यत् प्राविधिक्या उपयोगेन वित्तीयसमावेशने अभूतपूर्ववृद्धिप्राप्त्यर्थं साहाय्यं मिलितम् अस्मिन् उपवेशने वित्तमन्त्री निर्मलासीतारमण वित्तराज्यमन्त्री अनुरागठाकुरश्चापि उपस्थितौ आस्ताम्

एतदतिरिच्य पञ्चचत्वारिंशदधिकायुवर्षीया ये जनागभीरव्याधियुक्ता सन्ति तेभ्य अपि अस्मिन् चरणे सूच्यौषधानि प्रदास्यन्ते दशसहस्त सर्वकारीय चिकित्सालयेषु सूच्यौषधानि इमानि शुल्करहितानि भविष्यन्ति एवञ्च विंशतिसहस्त्रप्रशासनेतर सूच्यौषधीकरण केन्द्रेषु शुल्कप्रदानपूर्वकं सूच्यौषधनि स्प्रदास्यन्ते आकाशवाण्या कार्यक्रमे वार्ताहरान् सम्बोधयता अखिलभारतीयायुर्विज्ञानसंस्थानस्य निदेशकेन डॉरणदीपगुलेरिया वर्येण सम्पूर्णा प्रक्रिया एषा प्रतिपादिता

अस्यां मन्त्रणायां कोविड् सूच्यौषधाभियानस्य विषये विस्तरेण समीक्षा जाता अवधेयास्पदं वर्तते यत् अग्रिममासात् वरिष्ठनागरिकेभ्य अपि सूच्यौषधाभियानं प्रचलिष्यति तदनन्तरम् अभियानस्य अस्य अन्तर्जालीयरूपेण विस्तारार्थमपि मन्त्रणा अभूत्

एतेषु दिङ्निर्देशेषु निषेधाज्ञाक्षेत्राणिविशेषध्यानाकर्षक्षेत्राणि च सम्मिलितानि सन्ति एतदर्थं केन्द्रशासनेन सर्वाणि राज्यानिसर्वे केन्द्रशासितप्रदेशाश्च संसूचितानि

श्री शक्तितकांतदासेन एतदपि प्रतिपादितं यत् केन्द्रीयवित्तकोषेन एतदपि समीक्ष्यते यत् वित्तप्रदानकार्यक्रमा व्यवस्थितरूपेण संचालयेयु बालाकोटाक्रमणम् रक्षामन्त्री राजनाथ सिंह अवादीत् यत् बालाकोटाक्रमणस्य साफल्यं आतङ्कवादं विरुध्य भारतस्य दृढेच्छाशक्तिं प्रदर्शयति बालाकोट वाय्वाक्रमणस्य द्वितीय वर्षपूर्तिम् अभिलक्ष्य श्रीमता सिंहेन भारतीय वायुसेनाया अतुल्य पराक्रम समभिनन्दित

सम्प्रति आहत्य द्वा विंशति किलोग्रामत अधिक भारयुतेभ्य भाण्डेभ्य श्र्ल्कं देयं भवति ब्राजीलमकोवैक्सीन् ब्राजीलस्य स्वास्थ्यमन्त्रालयेन भारत बायोटेक् संस्थया निर्मित सूच्यौषधस्य द्विकोटिमितात्मक सूच्यौषध क्रयार्थं ह्य अनुबन्धे हस्ताक्षराणि कृतानि अशीति लक्ष सूच्यौषधानां प्रथमा आपूर्ति मार्चपर्यन्तं सम्भाविता अस्ति एतदन्तरा गतदिवसे ब्राजीले कोविड् नवदश संक्रमणेन एकचत्वारिंशदधिकपञ्चशतोत्तख्कसहस्त्र जना मृत्युमुपगता

भारतीयक्रीडनकानां प्राकृतिककलाकृतिं इदं क्रीडकनकमेलकं सम्पूर्णेऽपि विश्वे प्रसारयिष्यति नर्चर इंडिया इति व्यावसायिकोपक्रम काष्ठनिर्मातृणां क्रीडनकानां क्षेत्रे महत्वपूर्णं स्थानं विदधाति अयं व्यावसायिकोपक्रम अस्मिन् क्रीडनकमेलने मुख्यतया सहभागित्वं निभालयति